अस्याधिवेशनस्यारम्भो भारतीयः समयाऽनुसार सायं सार्ध षड् वादने भविष्यति तत्र प्रधानमन्त्रिणः श्रीमोदिनः समुद्रोधनम् अष्टतो नव वादन पर्यन्तं संभाव्यते विशेषज्ञाः विश्वसन्ति यत्प्रधानमन्त्रिणः चिर प्रतीक्षितस्य समुदद्रोधनस्य मुख्याकर्षणं पाक प्रायोजितस्य आतंकवादस्य दृढ़तया चर्चाम् अतिरिच्य वैश्विकस्तरे भारतीया कौषाणां प्रतिष्ठापनं भविष्यति जयशंकर द्विपाक्षिकसंभाषणानि विदेशमन्त्री एसजयशंकरः गतरात्रौ न्यूयॉर्क नगरे संयुक्त राष्ट्र परिषदो महाधिवेशनस्य पार्श्वेभागे ब्राजील जापान समेतानां नैकेषां देशनां समकक्षान् इतरांश्व नेतृन् मेलित्वां तैः साधं द्विपाक्षिकाणि विषयानि अधिकृत्य सम्भाषणं व्यदधात् तेन ट्वीट् संदेश द्वारा विभिन्नैः नेतृभिः सार्धं मेलनानां चित्राण्यपि प्रेषितानि ब्रिक्स आतंकवाद ब्राजील रशिया चाइना दक्षिणाफ्रीकेति पञ्चानां राष्ट्राणां ब्रिक्स इति संघटनेन विभिन्न रूपेष् प्रसृतम आतंकवाद कठोरतया विनिन्दता तस्य प्रभावि प्रतीकार विमर्शाय कस्याश्चिद अन्ताराष्ट्रिय संगोष्ठयाः आह्वानं विहितम् एतत्संघटनस्य सदस्य देशाः विदेश मन्त्रिभिः न्यूयॉर्क नगरे संयुक्त राष्ट्र महासाभायाः पार्श्वेभागे हयः समाचरिते वार्षिकोयवेशने प्रसतावोऽयम उपस्थापितः

सा गतदिवसे निजीय बैंके वित्तीय प्रतिष्ठानैश्व सार्धं मन्त्रणोप वेशनाऽनन्तरं वार्ताहैरः संभाषते स्म